राष्ट्रिय सुरक्षा परामर्शद अजित डोवाल तत्रत्य स्थितिं समीक्षित्ं सम्प्रति श्रीनगरे विराजते गतवासरे असौ शोपियां जनपदे स्थानीय जनान् अमिलत्

एतदालक्ष्य देशे नैकत्र आयोजनानि भवन्ति कर्नाटकम्वृष्टि कर्णाटके प्रबल वृष्टि कारणात् न्यूनातिन्यूना पब्च जना कालग्रासीभूता साहाय्योद्धार दलेन बेलगावी जनपदात् पञ्च विंशति सहस्राधिका उत्तर कन्नड जनपदाच्च त्रि सहस्राधिका जना स्रक्षित स्थलेष् प्रापिता मुख्यमन्त्री बीएसयेदियुरप्पा गतसायं साहाय्योद्वार व्यवस्थां समीक्षित्ं बेलगावी जनपद सम्प्राप्त अद्यासौ उदग्रयानेन जलाप्लाव दुष्प्रभावित स्थलानां निरीक्षणं विधास्यति

नौसेना स्थलसेना तटरक्षकबल राष्ट्रियापत्प्रबन्धन बलानां दलं स्थानीयाधिकारिभि समं सम्मिल्य साहाय्योद्वार कार्येष् रतम् अस्ति प्रभावित क्षेत्रेभ्य मङ्गलवासरं यावत् सप्तति सहम्राधिका जना स्रक्षित स्थानेष् प्रापिता मुम्बई बेंगलूरु राजमार्ग सुरक्षा दृष्टया अवरोधितो वर्तते महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीस श्रव्य दृश्य दूरसंवाद माध्यमेन जलौघपीडित जनपदाधिकारिभि सह संभाष्य तत्रत्य स्थितिं समैक्षत तेन कोल्हाप्र सांगली रायगढ़ पल्घर जलपदेष् जलौघ पीडितानां कृते पेयजलस्य भोजनस्य अन्येषां च आवश्यक वस्तूनां समुचित प्रबन्धाय सम्बद्धा अधिकारिणो विनिर्दिष्टा ओडिशावृष्टि ऋतु विभागेन संसूचितं यत् बङ्गाल खात्यां वायु प्रपीडनात् ओडिशा राज्यस्य कतिपय भागेषु श्व यावत् मूसलाधार वृष्टे संभावना प्रबलायते राज्य शासनेन जनपदाधिकारिण निर्दिष्टा यत्ते संभाव्य जलौघ स्थितिं सम्मुखीकर्तु सज्जिता भवेय्

अत्रावसरे प्रधानमन्त्रिणं नरेन्द्र मोदिनं भाजपा दलाध्यक्षम् अमित शाहं वरिष्ठं दलनेतारं लालकृष्ण आडवाणिनं च समेत्य परश्शतं जना उपस्थिता आसन्

अद्यतनीया स्पर्धा ग्याना राष्ट्रिय क्रीडाङ्गणे भारतीय समयान्सारि सायं सप्त वादनात् आरप्स्यते